अपराह सार्धंत्रिवादनपर्यन्तं षट्षष्टि दशमलव सप्त षट्मितै मतदातृभि स्वमताधिकारस्य प्रयोगं कृतम् पश्चिमबंगाल राज्ये विधानसभाया निर्वाचनस्य पंचम चरणस्य प्रचाराभियानं तीव्रतां भजते कृषि मन्त्री नरेन्द्र सिंह तोमर आन्दोलनकतृन् कृषकान् प्रति निवेदितवान् यत् कोविड संक्रमणानां प्रकरणेषु वृद्धि निध्याय तै आन्दोलनस्य समाप्ति करणीया देशे गतदिने सर्वाधिकानि पंचचत्वारिशत् उत्तर एकलक्ष संख्याकानि नूतनानि कोरोणा विषाणोप्रकरणानि समक्षम् आगतानि

भवन्तोऽपि अस्माभि सह सुरक्षाया उपायत्रयस्य सङ्कल्पं स्वीकुर्वन्तु मुखावरकं सन्धारयन्तु सामाजिकदौर्यं परिपालयन्तु पाणिपादं च यथासमयं प्रक्षालयन्तु औषधम् अपि समवधानता अपि

अपराह्न सार्धत्रिवादनपर्यन्तं षट्षष्टि दशमलव सप्त षटमितै मतदातृभि स्वमताधिकारस्य प्रयोगं कृतम् चत्रचत्वार्रिशत विधानसभा निर्वाचनक्षेत्रेष् निर्वाचनं प्रात सप्तवादनात् सायं सार्थषड़वादन पर्यन्तं प्रचलिष्यति अवधेयास्पदम अस्ति यत पश्चिमबंगाले निर्वाचनम अष्टचरणेष् विधीयते निर्वाचन स्वतन्त्रं निष्पक्षं च विधातूं सर्वें आवश्यका व्यवस्था कृता

कोविड महामारी निध्याय संक्रमितानां जनानां कृते डाक पत्राचार रित्नि माध्यमेन अपि मतदानस्य सौविध्यम् अस्तित चतुर्थे चरणे पंचजनपदानां चतुश्चत्वारिशत् आसनानां कृते पंचाशत् महिलाभि सह त्रयसप्तति अधिक त्रिशतं प्रत्याशिन निर्वाचने सन्ति राज्यस्य कचाबिहार जनपदे मतदानस्य प्रक्रियायाम् एव द्वयो भिन्नहिंस्रघटनयो पंचनजना मृता सन्ति निर्वाचन आयोगेन सितालक्ची विधानसभाया द्वाविंशत्यधिक एकशततमे मतदानकेन्द्रसंख्यायां मतदानं निरस्तीकृतम्

विभिन्नानां राजनीतिक दलानां नेतृभि अत्र महासभा क्रियन्ते अद्य वरिष्ठ भाजपादलीय नेता प्रधानमन्त्री च नरेन्द्रमोदी सिलीगुड़ी नगरे एकां जनसभां सम्बोधितवान् अत्र तेन राज्ये असोल पोरिबर्तन सोनार बांग्ला च एतदर्थं जना निवेदिता तोमर कृषि कृषि मन्त्री नरेन्द्र सिंह तोमर आन्दोलनकतृन् कृषकान् प्रति निवेदितवान् यत् कोविड संक्रमणानां प्रकरणेष् वृद्धि निध्याय तै आन्दोलनस्य समाप्ति करणीया तेन उक्तं यत् सर्वकार कृषकै सह वातां कृत्वा कृषकाणां सर्वेषां शंकानां समाधानं कत्तु दृढसंकल्पित अस्ति स प्रावोचत् यत् विभिन्नै कृषक संघटनै अर्थशास्त्र विद्धि च एषां त्रयाणां कृषि विधेयकानां समर्थनं कृतम्

कोरोनास्थिति अखिले हि देशे कोविड सूच्यौषधाभियानं द्रतगत्या प्रचलति केन्द्रीय स्वास्थ्यमन्त्रालयेन प्रतिपादितं यत् साम्प्रतं यावत् देशे प्राय अशीतिलक्षाधिक नवकोटि मितेभ्य लाभार्थिभ्य कोविड् प्रतिरोधि संक्रमण ऊनविंशति सूच्यौषधानि प्रदत्तानि केन्द्रीय स्वास्थ्यमन्त्रालयप्रत्यपादयत् यत् राष्ट्रे विगतास् चत्र्विंशतिहोरास् प्रायश चत्श्त्रिंशत लक्षमिताज ना वन्तषधिं प्राप्तसूच्यौ विगतास् चतुर्विंशतिहोरास् सर्वाधिकानि पंचचत्वारिशत् उत्तर एकलक्ष संख्याकानि नूतनानि कोरोणा विषाणो प्रकरणानि समक्षम् आगतानि अनेन सहैव देशे ब्रानी यावत संक्रमितानां कुलसंख्या समेध्य प्रायश द्वात्रिंशत लक्षाधिक एककोटिमिता संवृत्ता

अध्नावधि देशे कोरोणा कारणात् मृत्युम् उपगतानां संख्या समेध्य अष्टषष्टि सहम्राधिक एकलक्ष मिता संजातास्ति राजस्थान जनसंचार निरोध राजस्थान सर्वकारेण राज्ये कोरोना महामार्या संक्रमणं रोद्धूं नव नगरेष् रात्रौ जनानां संचारस्य निरोधस्य निर्देशा निर्दिष्टा अयं निरोध अप्रैल मासस्य त्रिशत् दिनांक पर्यन्तम् रात्रौ अष्टवादनात् प्रात षड्वादन पर्यन्तं प्रवर्तिष्यते

एतदभिलक्ष्य देशे श्व प्रभृति सूच्यौषध उत्सवस्य आयोजन करिष्यते अयं कार्यक्रम श्व अप्रैल मासस्य एकादश दिनांके प्रख्यातस्य समाजसेवकस्य ज्योतिबा फुले क्विस्य जयन्त्या अवसरे प्रारप्स्यते अपि च उत्सवस्य समापनम् अस्यैव मासस्य चतुर्दश दिनांके बाबासाहेब अम्बेडकर क्विस्य जयन्त्यावसरे भविष्यति

स नवदिल्ल्यां होम्योपैथी औषधि संयोजनम् ि विषयम् अभिलक्ष्य स्वविचारा प्रकटयति स्मा तेन प्रतिपादितं यत् कोविड महामार्या संक्रमण प्रकरणेष् होम्योपैथी त्विस्य अपि प्रयोग कृत य लाभप्रद आसीत्

खि क्रीडा मुम्बईनगरस्य वानखेड़े क्रीडांगणे सायं सार्धसप्तवादनात् भविष्यति